प्रधानमन्त्री नरेन्द्रमोदी बांग्लादेशीय प्रधानमन्त्री शेख हसीना च दृश्य श्रव्य परान्तर्जालीय माध्ययेन विधास्यन्त शिखरोपवेशनम्

भारते अनारतं प्रत्यावाप्तमितौ परिष्कार समभिवर्ध्य प्रतिशतं द्वे एकं दशमलवोन्तर पञ्चनवतिमित जाजायत

उभाभ्यामपि नेतृभ्यां द्विपक्षीय सम्बन्धान् समाश्रित्य व्यापकचर्चा विधास्यन्ते यास्मिन् कोविड नाइन्टीन् इति वैश्विक संक्रमण कालेऽपि सहयोगं अतोऽपि सबलीकत्तैं वर्तते अन्यतमम्

बाड़ग्लादेशीयया प्रधानमन्त्रिपदासीनया शेखहसीना वर्यया विगते वर्षे अक्टूबर मासे स्वीया आधिकारिकी भारत यात्रा सम्पादिता आसीत् अपरत प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अस्मिन् वर्षे मार्च मासे म्जीब बोरेशो इत्यस्य ऐतिहासिकावसरे एक दृश्यश्रव्यसन्देशोऽपि प्रख्यापित आसीत्

कैबिनेट केन्द्रीयमन्त्रिमण्डलस्य आर्थिक समित्या षड राजेभ्यं ह्य राज्येष् अन्तर्वति हस्तान्तरण वितरण प्रणाल्यान्तर्गतं एतत् सुददीकरण धिया उत्तरपुर्वीय विद्युत प्रणाली परिष्कार योजनान्तर्गतं अनुमानितः राशिः अनुमोदिता केन्द्रीय सुचना प्रसारण मन्त्रिणा प्रकाश जावडेकरेण स्पष्टीकृतं यत् निर्णयोऽयं पूर्वोत्तर क्षेत्रीय विकासाय प्रशासनस्य प्रतिबद्धतां प्रमाणयति इति

नवदिल्ल्यां वार्ताहर सम्मेलनं सम्बोधयता सूचना प्रसारण मन्त्रिणा प्रकाश जावडेकरवर्येण इदं संसूचितं अपरत प्रशासनेन भारतस्य केन्द्रीय विद्यत् नियामक आयोगं अमेरिकादेशीयं च अन्तरा सहमति ज्ञापनपत्रमपि हस्ताक्षरै प्रमाणीकृतम्

भारते अनारतं प्रत्यावाप्तमितौ परिष्कार समभिवध्य प्रतिशतं द्वे एकं दशमलवोन्तर पञ्चनवतिमत जाजायत विगते अहोरात्रे प्राय चतुस्रिंशत् जना स्वस्थीभूता